आप्रपाली प्रकरणे समावायस्य कार्मिकान् विरुध्य व्यवहार विषये न्यायायिक विवरणं प्रदातृ प्रवर्तननिदेशालय दिल्यारक्षिबलम् अन्यानि च अभिकरणानि सर्वोच्चन्यायालयेन निर्दिष्टानि

प्रधानमन्त्री जी सप्त यात्रा प्रधानमन्त्री नरेन्द्रमोदी देशत्रयस्य यत्रां सफलतया सम्पाद्य फ्रांसे बियारित्ज नगरे विशिटातिथित्वेन जी सप्त सम्मेलने सहभागित्वं विधाय अद्य प्रात स्वदेश प्रत्यागत जी सप्तसम्मेलन सहभागित्वार्थं तस्य अनया यात्रया विविधक्षेत्रेष् भारतस्य नेतृत्वक्षमता प्रदर्शिता अनया यात्रया मित्रदेशै सह भारतस्य सम्बन्धा दृढतरा भविष्यन्ति यद्यपि भारत जी सप्त समूहस्य नैवास्ति सदस्य तथापि विविध मब्चेष् तस्योपस्थिति अनुभूता जैव विविधता ऋतुदशापरिवर्तन पलास्टिक पदार्थस्यावरोध अंकीय क्षमता विषयेष् भारतस्य नवाचार पदक्षेपा विश्वनेतृभि सावधानतया श्रुता

गतदिने नवदिल्ल्यां समीक्षोपवेशनानन्तरं सञ्चारमाध्यमानि सम्बोधयता खाद्य नागरिकापूर्ति मन्त्रिणा एतत् सम्दीरितम्

सप्तोत्त द्रिसहस्रतम वर्षात् एकादशोत्तर द्रिसहस्रतम वर्ष मध्ये एकसहस्रकोटि रुप्यकात्मके सहकारि बैंक प्रवञ्चना प्रकरणेऽस्मिन् सममेव कृषक कार्यकर्तृदलस्य जयन्तपाटिलं काञ्चनबैंक कार्मिकान विरुध्य अपि प्राथमिकी पञ्जीकृता

असौ डेनिल मेदवेवेन पराभूत